अत्रावसरे देशद्वयेन षड् सन्धिपत्राणि हस्ताक्षरितानि

जम्मुकश्मीरस्य बारामुलाजनपदे सैन्य बलेन लश्कर ए तैयबा गुल्मस्य आतड़क्येको व्यापादित

भारतयात्रया देशद्वस्य स्दीर्घकालिका सम्बन्धा नवदिल्ल्यां संय्क्तवार्ताहरसम्मेलने श्रीमोदिना प्रोक्तं यत् देशदवयं स्वास्थ्यसंरक्षणे पर्यटने खाद्यप्रसंस्करणे खनने कृषिक्षेत्रे च परस्परसहभागितां संवर्धयिष्यति जाम्बिया देशस्य राष्ट्रपति अवोचत् यत् प्रधानमन्त्रिणा मादिना सह तदीयं सम्भाषणं रचनात्मकम् अवर्तत

सर्वोच्चन्यायालय चिदम्बरम सर्वोच्चन्यायालयेन अदय प्राक्तन् विदेशमन्त्रिण वरिष्ठ कांग्रेसनेत पी चिदम्बरमस्य निगडनात् मुक्तिसम्बदधा याचिका प्रत्याख्याता आई एन एक्स मीडिया धनवञ्चना प्रकरणे न्यायमूर्ति एनबी रमण न्यायमूर्ति एम शान्तनागौडर न्यायमूर्ति अजयरस्तोगी चेत्येषां खण्डपीठेन प्रोक्तं यत् प्रकरणस्य साक्षात् वादश्रवणं प्रधान न्यायाधीशस्य रञ्जन गोगोई वर्यस्य पीठेन श्क्रवासरे विधास्यते

सर्वादो विदेशमन्त्रिणा एसजयशङ्करेण नेपालस्य प्रधानमन्त्रिणा केपी शर्मा ओली वर्येण साकं शिष्टाचारमेलनं व्यधायि अस्माकं वार्ताहरेण सूचितं यत् भारतस्य विदेशमन्त्री नेपालविदेशमिन्त्रिणा सह भारतनेपाल संय्क्तायोगस्य पञ्चमोपवेशने भागम् अभजत्

आरक्षिभि सूचितं यत् प्रातः सार्धैकादशवादने मनाली रोहतांगक्षेत्रयो मध्ये भ्र्स्खलनम् सञ्जातम् अवधेयमस्ति यत् अयं मार्ग गतदिने एवं प्रारब्ध आसीत्

आरक्षिभि सूचितं यत् व्यापादितस्य आतङ्किन अभिज्ञानं बारामूलाया मोमिन गोजरी रूपेण अभवत् जम्मुकश्मीरारक्षिबलस्य विशेषारक्ष्यधिकारी बिलाल अहमद अपि अस्मिन् सड्घर्षे वीरताङ्गत आरक्षिभि घटनास्थलात् विस्फोटकानि आयुधानि च सम्प्राप्तानि जम्मुकश्मीरस्थिति जम्मूकश्मीरे विशेषतया कश्मीरोपत्यकायां श्रीनगरं समेत्य कपिपयक्षेत्रेष् दिवसावधौ प्रतिबन्धेष् शैथिल्यवशात् स्थिति सामान्या अवलोक्यते प्राशासनिकादेशन्सारम् अद्य उपत्यकायां माध्यमिक विद्यालया प्नरुद्घाटिता

महिलावर्गे भारतीयक्रीडिका अद्य निर्णायकचक्रे जापानवृन्दं सम्म्खीकरिष्यन्ति